एतदर्थ निवेद्यते यत् असावधानतायाः आचरणं मा व्यवहरन्त् सममेव अष्टादश वर्षात् अधिकवयीया सर्वे जना सूच्यौषधं स्वीक्र्वन्त्

भारतीय ऋतुविज्ञान विभागेन उक्तं यत् ताऊ ते इति समुद्रीय झंझावात अधिक रूपेण प्रभावी अभवत् अस्य मंगलवासरं यावत् ग्जरात प्रदेशस्य तट प्रापणस्य संभावना बलवती अस्ति यत्र अत्यधिकतया वर्षा भविष्यतीति स्निश्चितमस्ति

अनेन चक्रवातेन जूनागढ़ गिर सोमनाथ पोरबंदर द्वारका अमरेली राजकोट जामनगर दीव सहित गुजरातस्य सौराष्ट्र कच्छयोः भूरिशः वर्षाया संभावना अस्ति पश्चिमी रेलवे विभागेन निगदितं यत् गूजरातस्य सौराष्ट्रम उतो वा सौराष्ट्रतः गम्यमानानि षड्पंचाशत् रेलयानानि सुरक्षामभिधीय निरस्तीकृतानि महाराष्ट्रस्य तटीय नगरे रत्नागिर्या हयः आधिक्येन वर्षा जाता मुंबई नगरे अपि वर्षा बाहल्येन भवन्नस्ति ऋत् विज्ञान विभागेन काषायी संकेतात्मिकी सतर्कता सूचना प्रकटितास्ति येन समग्रेपि पश्चिमी महाराष्ट्रस्य पर्वतीय क्षेत्रेष् विशेषतया कोल्हापुर सतारयो अद्यारभ्य दिनद्वयाय आधिक्येन वर्षा संभावितास्ति प्रधानमंत्री नरेन्द्र मोदी चक्रवातस्य ताऊते इत्यस्य स्थिति विषये राज्यैः केन्द्रीय मंत्रालयैश्च साकं संबंधित आपदा प्रबंधन विभागानां च सन्नद्धताया समीक्षां कृतवान् हयः उच्चस्तरीयोपवेशने आध्यक्षतां निर्वहन् मोदिना जना सुरक्षित स्थलेष् नेतव्याः इति स्निश्चयाय अधिकारिणः निर्दिष्टाः तेन विद्युत दूरसंचार स्वास्थ्य पानीय जलस्य च उपलब्धता सुनिश्चयाय अपि अधिकारिणः निर्दिष्टाः क्केन्द्रीय स्वास्थ्य मंत्रालयेन अद्य उक्तं यत् केन्द्रेण साम्प्रतं यावत् राज्येभ्यः केनद्रशासितप्रदेशेभ्यश्च विंशति कोटितोप्यधिकानि कोविडसुच्यौषधीनि निःशलकतया उपलब्धीकृतानि केन्द्रीय सर्वकारः कोविडसूच्यौषधस्य उत्पादने आपूर्तेः वरिवर्धने च नैकविध प्रयासैः सह राज्येभ्यः केन्द्रशासितप्रदेशेभ्यश्च कोविडसूच्यौषधीनि प्रापणे तथा राष्ट्रव्यापी टीकाकरणाभियाने सहयोगमपि क्र्वन्नस्ति राज्यानां केन्द्रशासितप्रदेशानां च पार्श्वे सम्प्रत्यपि चत्रशीत्यधिक एककोटितोप्यधिकानि कोविडसूच्यौषधीनि सम्पलब्धानि सन्ति आगामीष् दवित्रीष् दिवसेस् प्रायशः एकपंचाशदधिकानि कोविडसूच्यौषधीनि एतेभ्यः राज्येभ्यः केन्द्रशासितप्रदेशेभ्यश्च प्रदास्यन्ते एतन्मध्ये केन्द्र प्रशासनेन भारत बायोटेक इत्यस्य कोवैक्सीन इति सूच्यौषधस्य उत्पादनं प्रतिमासं सार्धकोटितः विवर्ध्य दशकोटि करणस्य योजना अस्ति विनिर्मिता नीति आयोगस्य सदस्येन डॉक्टर वीके पॉलेन निगदितं यत् सार्वजनिक क्षेत्रस्य उपक्रम त्रयाणि सूच्यौषधस्य विनिर्माणे योजयिष्यन्ते येन प्रतिमासं एतस्योत्पादनं वर्धयित्वा त्रयोदश कोटिमितं भविष्यति कोविड अद्यतनम् देशे विगते दिने सप्ताधिकैकशतोतर एकादशसहस्राधिक त्रिलक्षमितानि नूतनानि कोरोनासंक्रमण प्रकरणानि प्राप्तानि एतदतिरिच्य सांप्रतं यावत् देशे सप्तलक्षाधिकद्विकोटितोप्यधिक जनाः कोरोनासंक्रमणमुक्ता अभूवन् देशे कोविडतः स्वस्थतामिति सम्प्रति दवि पञ्च दशमलवोतर चत्रशीतिप्रतिशन्मिता वर्तते वर्तमाने देशे उपचाराधीन कोविड संक्रमित रोगिणां संख्या अपचीय सांप्रतं चत्र्दश दशमलव षड् षड् मिता जाता भारतीयाय्र्विज्ञानपरिषदन्ग्णं विगते अहोरात्रे देशे द्वात्रिंशत्सहस्राधिक अष्टादशलक्षमितानि कोरोना परीक्षणानि सञ्जातानि प्रधानमंत्रिणा श्रीमता नरेन्द्रमोदिना अद्य उत्तरप्रदेश छतीसगढ़ राजस्थान प्ड्येरि राज्याणाम् म्ख्यमन्त्रिभि साकम् एका उपवेशनात्मिकी वार्ता विहिता अपि च महामार्या द्वितीयप्रकोपेण उत्पन्न स्थिते समीक्षा अपि कृता तेन राज्य सर्वकाराणाम् महामारी प्रबन्धन रणनीते रूपरेखा श्रता

रेलमन्त्रालयेन विगते पञ्चवर्ष षड्सहस्रप्लेटफॉर्म इत्यस्मिन् रेल स्थानके वाई फाईसौविध्यं प्रारंभम् कृतम् रेलमन्त्रालय उक्तवान् रेलवेविभाग डिजिटल इंडिया पदक्रमे नैरन्तर्येण योगदानं ददाति एवञ्च देशे हाई स्पीड वाई फाई सौंविध्यम् अपि ददाति अनेन पदक्रमेण ग्रामीण नागरीयक्षेत्रयो डिजिटल सौविध्यं संवर्धति मन्त्रालयेन हयः झारखण्डस्य हजारीबाग रेल स्थानके वाई फाई स्विधा कृता अवधेयास्पदम् वर्तते यत् षोडशाधिक द्वि सहस्रतमे वर्ष इयं योजना चालिता आसीत् शइजरायल फिलस्तीनदेशयो मध्ये संघर्षस्य अदय सप्तमे दिने संयुक्त राष्ट्र सुरक्षा परिषद उपवेशनं प्रचलति अन्ताराष्ट्रिय समृदायेन उभयो देशयो मध्ये वर्धमानं संघर्षम रोदधम आग्रह कृत अमरीकाया राष्ट्रपतिना जो बाइडेनेन इस्रायलदेशस्य प्रधानमन्त्रिणा बेन्यामिन नेतन्याहवर्येण फलस्तीनस्य राष्ट्रपतिना महमूद अब्बासेन च साकं हयः द्रभाषतंत्रमाध्यमेन वार्ता कृता फलिस्तीनी अधिकारिणा प्रोक्तं यत् देशयो मध्ये जायमाने संघर्ष हयः गाज़ायां पंचचत्वारिंशदधिकैकजना एवञ्च इस्रायलदेशे दशजना मृत्य्म् उपगता राजीवसाटव निधनम् कांग्रेस सांसदस्य राजीव साटवस्य अद्य प्णेनगरस्य निजी चिकित्सालये मृत्युः अभवत् किञ्चित् दिनपूर्वम् एव सः कोविड संक्रमणात् स्वस्थीभूतः आसीत् षड्चत्वारिंशत्वर्षीयः श्रीसाटव त्रयोविंशतिदिनं यावत् वेंटिलेटर इत्यस्मिन् आसने आसीत् स निमोनिया इत्यनेन रोगेण अपि पीड़ित आसीत् उप राष्ट्रपतिना एम वेंकैयानायड्रना प्रधानमंत्रिणा सूचना प्रसारण मन्त्रिणा च राज्यसभासदस्यस्य राजीव साटवस्य निधने गभीरः शोकः प्रकटितः अंतरराष्ट्रीय ओलिम्पिक समितेः अध्यक्षः थॉमस बाख तोक्यो ओलिम्पिक क्रीडायाः आयोजनस्य विषये सदस्य संघठनैः साकं सम्पवेशने विचारयन्नस्ति